म्ख्यमन्त्री अरविन्द केजरीवाल स्वीय नामांकनं प्रप्रयति

प्रधानमन्त्री नेपाल प्रधानमन्त्रिणा नरेन्द्रमोदिनोक्तं यत् भारतदेश नेपालदेशस्य सर्वागीण विकासे विश्वसनीय सहयोगिन भूमिका निर्वाहयति नेपालदेशीय प्रधानमन्त्रिणा केपीशर्मा ओली वर्येण समम् अद्य दृश्य श्रव्य सम्वादमाध्यमेन जोगबनी बिराटनगर एकीकृत अन्वीक्षण स्थात्रस्य संय्क्त तया उद्घाटनं विधाय श्रीमोदिना भणितं यत् प्रतिवेशि प्रथम इति तदीय प्रशासनस्य प्रथमा नीति वर्तते सीम्नि सम्पर्क परिष्कार विधानं अस्य महत्त्वपूर्ण चरणं विद्यते प्रधानमन्त्रिणोक्तं यत् भारतदेश सर्वै स्हृद् देशै साकं भद्रतम यातायात सुविधा विकास पथि व्यापार संस्कृति शिक्षा सदृश क्षेत्रेष् सम्बन्धा अग्रे सरणाय प्रतिबद्धं वर्तते तेनोदीरितं यत् भारत देश नेपाले रेल मार्ग सदृश सम्पर्क परियोजनास् कार्य विदधाति इदं दवितीयम् अन्वीक्षण स्थात्रं भारतस्य सहायतया आवागमन सौकर्यर्थ तत्र विर्निमितम् तेनोक्तं यत् पञ्चदशोत्तर द्विसहस्रतमे वर्षे नेपालदेशे समायाते भूकंपे भारतेन साहाय्योद्वार कार्येष् महत्तवपूर्ण भूमिका निर्व्य्यढ़ा नेपालस्य प्रधानमन्त्रिणा स्वीयोद्वोधने भारतस्य प्रयासा प्रशंसिता प्रधानमन्त्री प्रगति प्रधानमन्त्री नरेन्द्रमोदी श्व प्रगति कार्यक्रमस्य द दवात्रिंशे संवाद कार्यक्रमस्य अध्यक्षतां विधास्यति प्रगते एकत्रिंश तमे संवादे प्रधानमन्त्रिणा द्वादश लक्ष कोटि रूप्यकतोऽधिक परियोजनानां प्रगते समीक्षा विहिता

दिल्ली निर्वाचनम् दिल्ली विधानसभेय निर्वाचनानाञ्कृते नामांकन पत्र पत्रजीकरणस्यादय अन्तिमो दिवसो विद्यते नामांकन पत्राणामन्वीक्षणं श्व भविष्यति श्क्रवासरं यावत् नाम प्रत्यावर्तयिष्यन्ते आम आदमी दलस्य संयोजक अरविन्द केजरीवाल अद्य स्वीय नामांकनं पञ्जीकरिष्यते जनता दल यूनाइटेड आसनद्वये लोकजनशक्ति दलं च एकस्मिन् आसने निर्वाचनं स्पर्धयिष्यते कांग्रेसदलेनाद्य पञ्च प्रत्याशिनां तृतीया सूचना प्रकाशिता राज्यसभाया पूर्व सांसद परवेज हाशमी ओखलात निर्वाचनं स्पर्धिष्यते विधानसभाया सप्तति आसनेभ्य मतदानम् आगामि अष्टमे दिने मतदानगणना च फरवरी एकादशे भविता रविशंकर केन्द्रीय इलेक्ट्रॉनिक्स सूचना प्रविधि मन्त्रिणा रविशंकरप्रसादेनोक्तं यत् डिजिटल इंडिया अर्थात् एतादृशा प्रविधि या जनेभ्य कृते एव भवेत् जम्म मन्त्रिण यात्रा जम्म् कश्मीरे व्यापक जन सम्पर्क कार्यक्रमान्तर्गतं बहव केन्द्रीय मन्द्रिण यात्रारता वर्तन्ते

श्री बोल्सोनारो एक सप्तति तमीये गणतन्त्र दिवसे मुख्यातिथित्वेन विराजयिष्यति

डोनाल्ड ट्रम्प अमेरिकाया संसद उच्च सदने सीनेट इत्यस्मिन् राष्ट्रपतिं डोनाल्ड ट्रम्पं विरूदध्य ऐतिहासिक महाभियोगस्य कार्याचरणं प्रारब्धम् अमेरिकाया इतिहासे इयं तृतीया घटना विद्यते अमेरिकायां दश मासानन्तरं राष्ट्रपति निर्वाचनं भविष्यति